ब्रोकसभाअनिधिकतवसतिः केन्द्रीय ग़हनिर्माण नागर विषय मन्द्री हरदीप सिंह प्री दिल्ल्याः अनधिकृत वसतिष् निवासिभ्यो जनेभ्यः भूसम्पदाधिकार नियमन विधेयकं हयो लोकसभायाम् उपस्थापितवान् एतत् विधेयकस्य प्रावधानाऽन्सारि सम्प्रति पादोन दविसहस्र प्रायाणां दिल्ल्याः अनधिकृत वसतीनां निवासिनः स्वीय वासभूमेः पञ्जीकरणं विधापयित् प्रभविष्यन्ति प्रधानमन्त्रीगोष्ठी प्रधानमन्त्रिणा नरेन्द्र मोदिना प्रोक्तं यत् साम्प्रतं परिवर्तनोन्म्खेन भारतेन विगतेष् पञ्चस् वर्षेष् नैकानि महत्त्वाधायि परिवर्तनानि साक्षात्कृतानि नवदिल्ल्यां गतसायम् एकया निजीय दृश्य श्रव्य प्रणाल्या समायोजितायां संगोष्ठ्यां संनिहितः श्री मोदी अवादीत् यत् दशकेभ्यो लम्बिताः नैकाः समस्याः सम्प्रति समाहिताः

हयः संविधानदिवसम् उपलक्ष्य समायोजिते एकस्मिन् कार्यक्रमे समुपस्थितः श्री जयशंकरः अवोचत् यत् लोकतन्त्रस्य मानवाधिकाराणां च रक्षकाः नूनं संभूय आतंकवादम् उन्मूलयित् प्रयतेरन्